विपक्षिभि कृत कोलाहल संसदि नागरिकतासंशोधनाधिनियमे अन्यसंबंधितविषयेष् च

प्रधानमन्त्री श्रीनरेन्द्रमोदी असमप्रदेशस्य बोडोसन्धिविषयके हस्ताक्षरसम्बन्धे आयोज्यमाणे कार्यक्रमे कोकराझार इत्यत्र भागग्रहणं करिष्यति दिल्लीविधानसभानिर्वाचनप्रचारः स्वकीयां परमां पराकाष्ठायाम् जनसभा क्रियन्ते विविधराजनीतिकध्नन्धरै

जर्मनीदेशस्य स्वास्थ्यमन्त्रिवर्या जेन्स स्पाहन उक्तवती यत् संक्रमणेन अनेन विम्क्त्यर्थ पृथग् पृथग् प्रयासा नैव सफलिता भविष्यन्ति आशास्यते यत् जर्मनी ब्रिटेन फ्रांस इति देशत्रयाणां स्वास्थ्यमन्त्रिण अद्य एकस्मिन् उपवेशने चर्चा करिष्यन्ति कोरोनाविषाण्ना अध्ना यावत् चीनदेशस्य म्ख्यस्थलेष् प्रायश सार्द्धविंशतिसहस्रवास्तव्या अन्यस्थलेष् च द्वानवत्यृत्तरैकशतं जनाश्च संक्रमिता वर्तन्ते तत्र सप्तविंशत्युत्तरचतुश्शतं जना मृता जाता स्वास्थ्यसचिवा केन्द्रीयस्वास्थ्यसचिवा प्रीतिस्दनवर्यया कोरोनाविषाण्ना मुक्त्यर्थ दृश्यश्रव्यमाध्यमेन राज्याणां केन्द्रशासितप्रदेशाणां च स्वास्थ्यसचिवै सम्बन्धितमन्त्रालयाधिकारिभि समं समीक्षा कृता समीक्षोपवेशने स्वास्थ्यसचिवया सामूदायिकजागृति वातावरणीयनिरीक्षणं च सहितम् अन्यव्यवस्थानां कृते वार्ता कृता तया विमानपत्तनेष् सततनिरीक्षणाय बलं प्रदत्ते सति उक्तं यत् चीन सिंगाप्र थाईलैंड हांगकांग प्रभृतिदेशेभ्य भारतागतानां यात्रिणां परीक्षणाय दिल्ली कोलकाता म्म्बई कोचीन बेंगलूरू हैदराबाद चेन्नई स्थानां अन्ताराष्ट्रियविमानपत्तनेष् एयरो ब्रिज इत्यस्य उपयोगं कुर्वता अन्यस्य दवारस्य उपलब्धता सुनिश्चेया मन्त्रिण असमयात्रा प्रधानमन्त्री श्रीनरेन्द्रमोदी सप्तमे दिनांके असमप्रदेशस्य कोकराझार इत्यत्र स्वीयां यात्रां करिष्यति तत्र असौ बोडोसन्धिहस्ताक्षरानन्तरं आयोज्याणे समारोहे भागं स्वीकरिष्यति बोडोलैंड इत्यस्य जनपदेभ्यः सम्पूर्णादपि राज्याच्च चत्र्लक्षाधिका जना कार्यक्रमे अस्मिन् भागं भजिष्यन्ति असम प्रशासनेन राज्यीयविविधताप्रकटनार्थं विभिन्नसांस्कृतिका कार्यक्रमा प्रस्त्तयश्च प्रदर्शयिष्यते जनवरीमासे विहिते ऐतिहासिके बोडोसन्धिं स्मरणार्थ स तत्र जनसभैका अपि संबोधयिष्यति नवदिल्ल्यां जनवरीमासस्य सप्तविश्यां विहिते सन्धिपत्रे असमराज्यस्य महत्वपूर्णहितधारका स्त्रेकीकृता वर्तन्ते